अद्य पूर्ण राजकीय सम्मानेन सह तस्या अन्त्येष्टि भविष्यति भारतीय धाविका हिमादास चैकगणराज्ये नवमे मैस्टो इति क्रीडायोजने चत्ः शत मीटर धावन स्पर्धायां श्रेष्ठ प्रदर्शनं कृतवती भारतस्य पीवी सिन्धु इण्डोनेशिया मुक्त बैडमिण्टन स्पर्धायां महिलैकलवर्गस्य निर्णायकचक्रे प्रविष्टा शीला दिल्ल्यां प्राक्तन मुख्यमन्त्री प्रदेश कांग्रेस अध्यक्षा च शीला दीक्षित नवदिल्ल्यां हृदयाघातात् पञ्चतत्वे विलीना एकाशीति वर्षीया सा अस्वस्था अवर्तत अद्य पूर्ण राजकीय सम्मानेन सह तस्या अन्त्येष्टि भविष्यति दिल्ली प्रशासनेन च तस्या सम्माने द्विदिवसीय राजकीय शोकस्य उद्घोषणा कृताऽस्ति राजनाथ रक्षामन्त्री राजनाथसिंह गतदिने जम्मूकश्मीरस्य कठ्आ जनपदे उझ सेतो सोवा जनपदे च बसंतर सेतो उद्घाटनं अकरोत् तेनोक्तं यत् राजमार्ग सेत् च कस्यापि राष्ट्रस्य जीवनरेखा वर्तते द्रस्थितानां क्षेत्राणां सामाजिक आर्थिक विकासे उभयो महत्त्वपूर्ण योगदानं भवति श्रीसिंहेन जम्मू कश्मीर राजमार्ग रेल सम्पर्क विषये प्रशासनस्य प्रतिबद्धता पुन प्रकाटिता नितिनगडकरी केन्द्रीय परिवहन मन्त्री नितिनगडकरी अवोचत् यत् बैंकिंगक्षेत्रं देशस्य अर्थव्यवस्थाया विकासाय महत्त्वप्र्ण विद्यते गडकरिणा नागपुरे इण्डियन बैंकस्य क्षेत्रीय कार्यालयस्य उद्घाटन समारोहे एतत् प्रोक्तम् तेनोक्त यत् इदानी आवश्यकमस्ति बैंक समवाया नूतन परियोजनानां साहाय्यं यच्छन्त् हरदीपसिंह नागरिकोड्डनमंत्री हरदीपसिंहपूरी अवचोत् यत् तदीयो मन्त्रालयो वायुसुरक्षामानकै सह कथमपि सन्धिं नैव करिष्यति असौ नवदिल्ल्यां गतदिने नागरिकोड्डयन कार्गो सम्मान समारोहं सम्बोधयति स्म तेन विमान उद्योग सम्बद्ध पक्षा नागरिकोड्डयनक्षेत्रे दृढतया कार्याचरणाय अध्यर्थिता

मृतकानां प्रति संवेदना प्रकाटिता लखनऊ नगरे वार्ताहरै सह सम्भाषणे तेनोक्तं यत् प्रशासनेन शीघ्रं कार्याचरणं विधाय दोषिण अधिकारिण निलम्बिता समेऽपि आरोपिण निगडिता जनपदाधिकारिणे च सम्चितनिर्देशा प्रदत्त वर्धमान पश्चिमबंगाले वर्धमान रेल स्थानकस्य नाम सम्प्रति बट्केश्वरदत्तस्थानकं भविष्यति वर्धमानं स्वतंत्रता सेनानिन ब्ट्केश्वरदत्तस्य जन्मभूमि वर्तते केन्द्रीय गृह राज्यमन्त्रिणा नित्यानन्द रॉयेन अस्योद्रोषणा कृता प्रोक्तं च यत् विषयेऽस्मिन् औपचारिकता शीघ्रमेव पूर्णा भविष्यति बीएसएफ सीम स्रक्षा बलं कारगिलयुद्धस्य विंशति वर्षपूर्तों साप्ताहिक कार्यक्रमान् आयोजति